महाराष्ट्रम् महाराष्ट्रस्य नव निर्वाचितेन मुख्यमन्त्रिणा देवेन्द्रफडणवीसेन स्वपदात् त्यागपत्रं प्रदत्तम् अमुना अद्य सायं राज्यपालाय भगतसिंहकोश्यारी वर्याय प्रदत्तम् निज त्यागपत्रम् मुम्बईनगरे वार्ताभिकरणै सार्धं संवादक्रमे फडणवीस प्रत्यपादयत् यत् ि ् सी पी दलनेत्ः अजितपवारस्य उपम्ख्यमन्त्रिपदात् त्यागपत्र प्रदानात्परं तदीयप्रशासनं बहमत परीक्षणे नैव साफल्यमवाप्स्यति अमृनोक्त यत् भाजपादलं विपक्षिभूमिकाया उत्तरदायित्वं सर्वात्मना निभालयिष्यति इत पूर्व शीर्षन्यायालयेन महाराष्ट्र विधानसभायां बहुमतं प्रस्तोतुं दलद्वयं समादिष्टमासीत् ध्येयमस्ति यत् शिवसेना उ सी पी कांग्रेस दलानां संयुत्या शीर्षन्यायालये का याचिका प्रस्तृतासीत् यस्यां उल्लेख आसीत् यत् अल्प विधायक परिसंख्यातं भाजपादलं प्रशासनविरचनाय नैव समाईम् अत शिवसेना संयृति दलाय प्रशासनरचनार्थं राज्यपाल सभामन्त्रयेत् इदमेव प्रकरणमभिलक्ष्य अद्य उच्चतमन्यायालये वादश्रवणां सभाचरति स्म ससत्कार्यजातम् राज्यसभायामद्य ऐषम ट्रांस्जेन्डर इति क्लीबानां संरक्षणाधिकार विषयकं विधेयकम् अभ्य्पगतम् लोकसभाया कार्यजातमपि द्वि वादनं यावत् समारब्धम्

नवम्बर मासस्य षड्विंशे दिनांके वि नवचत्वारिशदत्तरैकोनविंशति शत तमें वर्षे संविधानसभया संविधानमिदम अंगीकृतम् तदन् पंचाशदत्तरैकोनविंशति शत तमे वर्षे नवम्बर षड्डविंश्यां तिथौ संविधानस्य प्रावधानानि पूर्णोतोदृशा प्रभावम् आपन्नानि त्रेद्धि आसीत् नूतनस्य भारतीय जनतान्त्रिकैतिहासस्य प्रारम्भ ऐषम संविधान दिवसस्य विशिष्टे सप्तति वर्ष पूर्त्यवसोर संसद केन्द्रीयकक्षे समाकारितम् संय्क्तसत्रम् संय्क्ताधिवेशन् सम्बोधयता राष्ट्रपतिना रामनाथ कोविन्देन अधिकार कर्त्तव्यं च अनुयोन्याश्रितत्वेनोदीरितम प्रोक्तंच अधिकार विषय चिन्तयन्द्रि नागरिकै तत्कर्तव्य विषयोऽपि विचारणीय अत्रावसरे सम्भाषमाण उपराष्ट्रपति मे् वेंकैया नायड् प्रावोचत् विगतेष् सप्तति वर्षेष् देश लोकतान्त्रिक संविधानस्य संवर्धनेन सहैव उत्सशक्तिकरणार्थंमपि प्रयासरतं विद्यते प्रधानमन्त्रिणा नरेन्द्रमोदिनापि संयुक्ताधिवेशनं सम्बोधयता संविधानस्य समग्रताया शक्तेशच उल्लेखो विहित लोकसभाध्यक्षेण ओम्बिरलावयेंण देशस्य विकासाय संविधानस्य महत्वातिशायिनी भूमिका प्रतिपादिता

जम्मूकश्मीरम् जम्मूकश्मीर अद्यापराह्ने कश्मीर विश्वविद्यालयात् बहि द्रापादिते विस्फोटाक्रमणे त्रयो नागरिका आहता